प्रधानमंत्री नरेन्द्र मोदी स्वतन्द्रताया अमृत महोत्सव समारोहस्य श्भारम्भं श्व करिष्यति उत्तराखण्डे अपि एकं राष्ट्रं एकं अन्नान्मति प्रमाणपत्रम् प्रय्क्तम् देशे अदयावधि षड्पंचाशदधिक दवि कोटि जनै कोरोना प्रतिरोधि सूच्यौषधं सम्प्राप्तम्

राष्ट्रपतिना प्रतिपादितं यत् नवीन शिक्षा नीति भारतीय संस्कृते नैतिक मूल्यानां प्रोत्सहनाय कटिबदधा

सः ग्जरात् राज्ये साबरमती आश्रमत एकस्या पदयात्राया उद्घाटनं विधाय समारोहस्य श्भारम्भं विधास्यति अस्यां पदयात्रायां एकाशीति जना विद्यन्ते अहमदाबाद नगरस्थ साबरमती आश्रमत नवसारी नगरे दाण्डी पर्यन्तं प्रवर्तमाना इयं पदयात्रा पंचविंशतिदिन अनन्तरं अप्रैल मासस्य पंच दिनांक पर्यन्तं प्रवर्तिष्यते दाण्डी पर्यन्तं प्रवर्तमानायां यात्रायां विविध समूहानां जना साम्मिलिता भविष्यन्ति

प्रधानमन्त्री भारतस्य स्वतन्त्रताया पंचसप्तति वर्षपूर्त्यवसरात् पूर्वे प्रवर्तमानम् इमं समारोहम् अभिलक्ष्य सन्निहितां जनसभामपि सम्बोधयिष्यति आस्मिन्नवसरे सः नैकानां सांस्कृतिक कार्यकलापानां समुद्घाटनमपि विधास्यति समारोहं परिपालयित्ं राज्यै केन्द्रशासित प्रदेशैरपि विभिन्ना कार्यक्रमा आयोजयिष्यन्ते

सहैव कोरोना महामार्या स्वस्थतामिति अध्ना षण्णवति दशमलव नव दविमिता पंजीकृता विगते अहोरात्रे अष्टादशसहस्रं जना स्वस्थीभूता अपि च षड्विंशत्यधिकैकशतं रोगिण अनेन संक्रमणेन मृत्युं उपगता

एतस्मिन् क्रमे उत्तराखण्डराज्यमपि समाविष्टमस्ति येष् राज्येष् इयं व्यवस्था प्रचलति तेष् सकल राज्य उत्पादस्य शून्य दशमलव द्वि पंच प्रतिशतम् अतिरिच्य ऋणस्य स्विधा उपलब्धा भविष्यति ध्यातव्यमस्ति यत् अस्यां व्यवस्थायां राष्ट्रिय खाद्य सुरक्षा अधिनियमस्य अन्य कल्याणकारी योजनजाया च अन्तर्गते जना लाभान्विता भविष्यन्ति प्रधानमन्त्री भगवदगीता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितम् यत् आत्मनिर्भर भारत अभियानं सम्पूर्ण मानवताया सम्पन्नतायै अस्ति अपि च अभियानमिदं विश्वस्य कृते लाभप्रदं वर्तते श्रीमता मोदिना वार्तेयं स्वामिन चिद्भवानन्दस्य भगवद्गीताया किंडल् इति आन्तर्जालिक संस्करणस्य विमोचन समारोहे कथिता तेनोक्तं यत् कोविड नवदश महामार्या द्ष्प्रभावेन जना चिन्तिता आसन् परं च भारतीय वैज्ञानिकै सूच्यौषधं निर्मितम् यत् गौरवस्य विषयो वर्तते

यस्मिन् विचारा सन्ति गीताया मूलसन्देश कर्म एव अस्ति अद्यत्वे समाजे ई प्स्तकानि य्वस् लोकप्रियानि इति तेन निष्पादितम् प्रधानमन्त्री प्रोक्तवान् यत् इदं ई संस्करणम् शाश्वत गीता गौरवशाली तमिल संस्कृति उभयो मध्ये सम्पर्कमपि सबलं करिष्यति

तत्रैव अनन्तनाग जनपदे अन्तर्जालसेवा बाधिता

तेन संसूचितं यत् संगठेन आई फोन दवादवाशसंस्करणस्य अदयतन चलदरभाषयन्त्राणाम् निर्माणकार्याणि भारते एव भविष्यन्ति

अन्ना विश्वविद्यालयस्य एकचत्वारिंशत्तमं दीक्षान्त समारोहं सम्बोधयता राष्ट्रपतिना प्रोक्तं यत् नवीन शिक्षा नीतौ नैतिक मूल्यानाम् अपि समावेश अस्ति यस्मात् भारतीय संस्कृतिं वयं ज्ञात् शकृन्म तेन विश्वास व्यक्त यत् अनया नीत्या ज्ञानस्य शिक्षायाश्च नवीन य्गस्य प्रारम्भ भविष्यति अस्या उद्देश्या अन्सन्धानं कौशलं विशेषज्ञता च वर्तन्ते इयं नीति वर्तमान वंशेभ्य आवश्यकी महत्वपूर्णा च वर्तते महाराष्ट्र लाकडाउन महाराष्ट्रराज्यस्य नागप्र नगरे कोरोना विषाणो संक्रमितानां जनानां संख्यायां वृद्धि दरीदृश्यते गतदिने संक्रमिताना सप्तदश शत प्रकरणानि पुष्टिंगतानि